वायसेना भारतीया वाय्सेना अद्य बालाकोटे विहितस्य तदीय वायव्याक्रमणस्य प्रथमो वर्षपूर्ति दिनांक समायोजयति पाकिस्ताने खैबर पख्तूनख्वा प्रान्तस्य बालाकोट स्थले विगतवर्षे अस्मिन्नेव दिनांके आतंकवादिनां प्रशिक्षण केन्द्राणि वाय्सेनया विनष्टानि आसन् दिनमिदम्पलक्ष्य रक्षामन्त्री राजनाथ सिंह भारतीय वाय्सेनाया शौर्य पराक्रमं प्रशंसितवान्

श्रीराजनाथसिंहेनोक्तं यत् एतादृक्कठोर पदक्षेप आतंकवादोन्मूलनार्थ भारतस्य दृढ संकल्पं स्मारयति अपरत्र वायुसेनाप्रमुख एयर चीफ मार्शल आरकेएस भदौरिया अद्य बालाकोटाक्रमणस्य यशस्विभि सैन्यभटै सार्ध अभिलत् केन्द्वीय मन्त्रिमंडलम् केन्द्रीय मन्त्रिमण्डलेनाद्य नूतनत्वेन प्रतिष्ठापितांगते केन्द्रशासिते प्रदेशे जम्मूकश्मीरे केन्द्रस्य विधि व्यवस्था प्रवर्तनार्थ स्वीयान्मोदनं प्रदत्तम् एतदन्सारि जम्मूकश्मीरे साम्प्रतं केन्द्रप्रशासनस्य समेऽपि विधय प्रवर्तयिष्यन्ते विगतवर्षे जम्मूकश्मीरस्य पुनर्गठनाधिनियमान्तर्गतं सुनिश्चितं धाराया षण्णनति संख्याकस्यान्पालनपूर्वकं निर्णयोऽयं विहित केन्द्रप्रशासनेन एतदतिरिच्च अदय समन्ष्ठिते केन्द्रीय मन्द्रिमण्डलोपवेशने परिचर्चिता अन्येऽपि विषया वार्ताहरा विज्ञापिता केन्द्रीय सूचना प्रसारण मन्त्रिणा प्रकाशजावडेकर वर्येण परिचर्चितेष् विषयेष् भाटकित क्क्षि विधेयकम् अपि समाविष्टमस्ति दिल्ली स्थिति दिल्ल्या आरक्षि आयुक्त अमूल्य पटनायको ब्रूते यत् दिल्ल्या हिंसा जनित क्षेत्रेष् स्थिति सम्प्रति सामान्या विद्यते स्थितिं नियन्त्रित् सृदृढ स्रक्षा प्रबन्धा उपकल्पिता सन्ति अत्र हिंसाचरणे मृतकानां संख्या समेध्य अष्टादश संवृत्ता प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दिल्ल्या उत्तर पूर्वीय क्षेत्राणां स्थिति समीक्षिता ट्वीट् सन्देश माध्यमेन प्रधानमन्त्रिणा कथितं यत् आरक्षिबलानि अन्यानि संघटनानि चापि दिल्ल्यां शान्ति सन्धारणार्थ स्थितिं नियन्त्रित्ं च सर्वात्मना प्रयतन्ते अम्नोक्तं शान्ति सद्गाव सन्धारणं हि अस्मदीयं चरित्रमस्ति एतदन्पालनार्थ जना अध्यर्थिता प्रधानमन्त्रिणा तट्रैव राष्ट्रिय स्रक्षा सम्मर्शद अजीत डोभालोऽपि हिंसा प्रभावितानि क्षेत्राणि उपेत्य स्थितिं समीक्षितवान् स्थिति नियन्त्रित्म् आरक्षिबलेन विधीयमाना प्रयासा अम्ना प्रशंसिता

साम्प्रतं मार्चमासस्य त्रयोविंश्यां तिथौ समाचरिष्यति उक्त प्रकरणे तर्कवादश्रवणम् प्रदर्शन प्रकरणमिदं समाधातूं नियुक्तानां वार्ताकाराणां स्वीय निर्णय शीर्षन्यायालयेन सम्चित प्रत्याख्यात प्रोक्तञ्च स्थितिरस्ति महच्चिन्तनीया वादश्रवणात् प्राक् स्थिति सामान्या आवश्यकीति प्रत्यपादयत् उच्चतमन्यायालय चीनदेश कोरोना भारतमद्य कोरोना विषाण् संक्रमणेन द्ष्प्रभावितं चीनस्य व्हाननगरं प्रति प्नर्प्रेषयति भारतीयं विमानमेकम् चिकित्सोपकरणानि साहाय्य सामग्री संवलितं च भविता विमानमिदम् प्रत्यागमन काले विमानमिदं व्हान नगरात् विंशत्यधिक शतं भारतीया प्रतिवेशि राष्ट्राणां नागरिकाश्च भारतम् प्रापयिष्यति